प्रधानमन्त्रीराष्टियलोकतान्त्रिकसंयतिः प्रधानमन्त्री नरेन्द्र मोदी प्रावोचत् यत् राष्ट्रिय लोकतान्त्रिक संय्ति प्रशासनेन विगतेष् षण्मासेष् विकासाय सामाजिक शक्ति करणाय भारतीयैक्यभावस्य स्ृृढीकरणाय च नैके निर्णयाः विहिताः

तेनोक्तं यत् सबका साथ सबका विकास सबका विश्वास इत्य्द्धोष पूर्वकं राष्ट्रिय लोकतान्त्रिक संय्ति शासनं सकलान् अपि भारतीयान् शक्तीकर्त् देशं च सम्न्नेत् नवोत्साहेन सर्वात्मना प्रयतिष्यते अपरतः एतस्य संय्ति शासनस्य द्वितीय कार्यकालस्य षण्मास पूर्त्यवसरे गतवासरे नवदिल्ल्यां वार्ताहरैः भाषमाणः सूचना प्रसारण मन्त्री प्रकाश जावडेकरः उक्तवान् यत् प्रशासनेन आर्थिक मान्द्यं सम्म्खीकर्त् नैके पदक्षेपाः विहिताः सन्ति अमित शाहः गहमन्त्री अमित शाहः आशां प्रकाशितवान् यत् चतुर्विशत्यधिक दविसहस्रतम ख्रीस्ताब्दं यावत् भारतीया अर्थव्यवस्था पञ्चखर्ब्द डॉलर् मुद्रात्मिका भविष्यति इत्थम् अस्मदीयार्थव्यवस्था विश्वस्य पञ्चस् सर्वोच्चार्थ व्यवस्थास् अन्यतमा भविष्यति असौ ह्यः म्म्बष्याम् उत्कृष्टतम वाणिज्याय इकॉनॉमिक् टाइम्स् प्रस्कार वितरण समारोहे अभिभाषते स्म

गतदिने उपान्त्यचक्रीये दवन्दवे सौरभेण कोरिया देशीयं हियो क्वांग ही इत्येनं पराजितम् अपरतः महिलैकलवर्गे भारतीया बैडमिण्टन् तारका रित्पर्णा दासः मालिकायाः बहिर्भूता

वॉबीबॉब त्रयोदश्यां दक्षिणैशिया स्पर्धा मालिकायां भारतीय महिला वॉलीबॉल् दलं निर्णायकचक्र प्राविशत् गतसायं काठामाण्डौ आयोजितायां प्रथमायाम् उपान्त्य चक्रीय स्पर्धायां भारतेन मालदीव्स दलं पराजितम्